सम्पूर्णदर्शअद्यावधौ प्रायश सार्ध त्रयोदशकोटिप्यधिक जन किोरोना प्रतिरोधि सूच्यौषधम् अधिगतम् पंजाब सर्वकारण मईमासस्य प्रथमदिनांकात् अष्टादशवर्षात् पंचचत्वारिशत् वर्षपर्यन्तम् जनखि कोरोना सूच्यौषधदानाभियानं प्रारप्स्यतक्ष भारतीय वायुस्खिला प्रिणवायो विस्ताराय स्वक्रिया तीव्री कृता पश्चिमबंगाल विधानसभानिर्वाचनस्य सप्तमचरणस्य प्रचार अभियानं अद्य सायंकाल सिमाप्तम्

भवन्त भवत्य च सुरक्षाया उपायद्रयस्य संकल्पं स्वीकृत्य सुरक्षिता भवन्तु मुखावरकं सन्धारयन्तु सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु

उपवध्यक्ष सित्मिन् महाराष्ट्र उत्तरप्रदर्श मध्यप्रदर्श छत्तीसगढ क्रिज ग्जरात दिल्ली राजस्थान कर्नाटक तमिलनाड़ राज्यानां मुख्यमन्त्रिणाः भागं गृहीतवन्त ध्यातव्यमस्ति यत् दृष्ण प्रतिदिनं संक्रमणस्य पंचसप्ततिप्रतिशतं अंशम् एत्यू राज्यू िअस्ति

इत प्राक् अद्य प्रधानमन्त्री सर्वकारस्य वरिष्ठ अधिकारिभि साकं अपि कोरोना महामार्या स्थितिं ज्ञातुं एका समीक्षा अपि कृतवान्

स्वास्थ्यमन्त्रालयः प्रोक्तं यत् विगत अिहोरात्र प्रिंशदधिकत्रिसप्ततिशतोत्तर द्वात्रिंशत्सहस्रोत्तरत्रिलक्ष जना अन्त संक्रमणर्त संक्रमिता अभूवन्

मुख्यमन्त्रिणा प्रतिपादित यत् पंजाबराज्यर क्रिच्चिप्रशासनात् बृहस्पतिवासर क्रीवि शील्ड इत्यस्य चतुर्लक्ष अंशानि सम्प्राप्तानि

पश्चिम बंगाल पश्चिम बंगालब्रिधानसभानिर्वाचनस्य सप्तचरणस्य प्रचार अद्य सायंकालब्रिमाप्त कोविड संक्रमणस्य द्वष्प्रभावं परिलक्ष्य निर्वाचन आयोगई प्रचार अभियानम् स्थगितम् आयोगई निष्पादितं यत् जनसभास् पंचशतात् अधिका जना न भवरूँ अवध्यप्रियदं वर्तत जित् मतदान प्रचारभियान समय ज़ना नक्प्रिश्च कोरोना प्रबन्धन नियमानां उल्लंघनं कृतवन्त सममद्द आयोग विनिवक्तिवान् यत् राजनीतिकदलानि कोरोना प्रबन्धस्य नियमान् कठोरतया परिपालयन्तु

जना भ्रामक स्थितौ न भवन्तु